प्रधानमन्त्री मथरा प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य मथ्रातः राष्ट्रिय पश् रोग निरोध कार्यक्रमस्य श्भारम्भं विधास्यति अस्य कार्यक्रमस्य मुख्यमुद्देश्यम् आगामिष् पश्वस् वर्षेष् देशस्य पश्वाशत्कोट्यधिकेष् पश्धनेष् परिव्याप्तानां मुखचरणसम्बन्धि रोगाणां ब्रसेलोसिस रोगस्य च उन्मूलनं विद्यते सहैव श्रीमोदिना अवसरेऽस्मिन् राष्ट्रिय कृत्रिम वीर्यारोपण कार्यक्रमोऽपि समारप्स्यते ततः सः तत्रैवायोज्यमानं पश्विज्ञानारोग्य मेलकं गमिष्यति एतदतिरिच्य प्रधानमन्त्रिणा अद्य देशस्य सकलेष् सप्ताशीत्यधिक षट्शत जनपदेष् क्रषिविज्ञानकेन्द्र गताः कार्यशालाः अपि समुद्घाटयिष्यन्ते

नवदिल्ल्या स्पष्टीकृतं यद् विगत दिवसेषु तद्राज्यस्य स्वरूप परिवर्तनं स्वीय सांवैधानिक प्रावधानस्य अनुरूपमेव समन्ष्ठितम् एतञ्च वक्तव्यं गतदिवसे जिनेवायां संयुक्त राष्ट्रिय मानवाधिकार परिषदि भारतीय पक्षं सम्प स्थापयन्त्या विदेश मन्त्रालयस्य पूर्वक्षेत्रीय सचिवया विजय ठाकुर सिंह वर्यया प्रकाशितम् सा परिषदि स्फुटं प्रावोचत् यच्चिरात् अनुवर्तमानं पारेसीमातंकवाद्याक्रमणं प्रतिकर्तू भारतीय प्रशासनस्य कृते एतत् पदक्षेप ग्रहणं परमावश्यकं संवत्तम् आसीत्